शीघ्रमेव साहमत्यं सम्भाव्यते

सप्त श राज्येष् एकस्मिन केन्द्र शासित राज्ये च लोकसभाया आसनदवये विधानसभायाश्च एकपञ्चाशद आसनेष् उपनिर्वाचनानि श्व समायोजयिष्यन्ते हरियाणायां प्रशासनारूढस्य भाजपा दलस्य कांग्रेसस्य इण्डियन नेशनल लोकदलस्य च मध्ये मुख्या त्रिकोणीया स्पर्धा सञ्जायते राज्ये नवति विधानसभासनेभ्य ऊनसप्तत्यृतर एक शताधिक एक सहस्र संख्याका प्रत्याशिनो निर्वाचन समरे समवतीर्णा सन्ति

भारतीय भटै आतंकि शिविराणि ध्वस्तीकर्त् तोपास्त्राणामपि प्रयोग कृत

भारतीय सैन्यबलेने कार्यान्वयनं क्पवाड़ा जनप स्य तंगधार क्षेत्रे पाकिस्तानीयै अकारणाविष्कृत वैर ारुणै विहित गोलिका वर्षणस्योतरे कृतमस्ति

इप् सर्व राज्यस्य शिक्षामन्त्रिणा डॉक्टर प्रभ्रामचतुर्ध्रिणा प्रतिपाधितम अम्नोक्तं यत विद्यालयेष् शिक्षकाणां रिक्तप ान्यपि यथाशीघ्रं भरिष्यन्ते

भारतीया जना फिलीपींसस्य अर्थव्यवस्थां समाजञ्च स्दृढीकर्त् योग ानं यच्छन्तो वर्तन्ते अद्य फिलीपींस राजधान्यां मनीलायां भारतीय सम् ायं सम्बोधयन असौ न्यग ात ायत भारतमपि अन्येग्रेशष् स्थितै भारतीयै साहाय्यं अपेक्ष्यते अनेन तत्रस्थिता भारतीया भारते नवाचार निवेश अन्संधान शिक्षा क्षेत्रेष्पलब्ध अवसराणां लाभग्रहणाय अध्यर्थिता

अस्मिन ा य्द्धाभ्यासे सैन्यबलेन आग्नेय प्रक्षेप्यास्त्राणां तोपास्त्राणां चाभ्यास प्र र्शनं करिष्यते विविध आयुधै प्रविधिभिश्च सुसज्जितानि सैन्यबलानि सशस्त्रबलानि वाय्बलानि चास्मिनाय्द्धाभ्यासे भागं निर्वहन्ति